श्व आरभ्य पंचत्वारिंशत्वर्षतो अधिका जना अपि कोरोना प्रतिरोधि सूच्यौषधं प्राप्तुं शक्नुवन्ति

केन्द्रीयसर्वकारेण प्रोडक्शन् लिंक्ड् इंसेंटिव स्कीम् इति योजनान्तर्गतं नवशताधिक दशसहस्रकोटि रूप्यकाणि खाद्यप्रसंस्करणक्षेत्राय स्वीकृतानि असम पश्चिम बंगालयोः विधानसभानिर्वाचनानां श्वस्तनद्वितीय चरणाय मतदानस्य सर्वाः आवश्यकसज्जाः सन्ति पूर्णाः रफाल इति योद्धविमानस्य चतुर्थ क्षेप अद्य सायंकाले फ्रांसत गुजरातस्य जामनगर विमानपत्तनं प्राप्स्यति भारतीयरिजर्वबैंकद्वारा अवित्तकोषीयसंस्थाभि प्रदीयमान ऋणेष् कुसीदप्रतिशतं पंचदश आधारांकमित न्यूनीकृतम्

यदि जना केनापि रोगेण पीडिता सन्ति तथापि ते अनेन सूच्यौषधेन लाभान्विता भविष्यन्ति इति

स्वास्थ्यमन्त्रालयेन निष्पादितं यत् ह्य चत्वारिशदधिकनवदशलक्षं जना सूच्यौषधम् इदं प्राप्तवन्त तत्रैव कोविड महामार्या स्वस्थतामिति साम्प्रतं चतुर्णवति दशमलव एकैकमिता अंकिता अपि च विगतासु चतुर्विशतिहोरासु प्रायश एकचत्वारिशत्सहस्रं जना स्वस्थीभूय गृहं प्रत्यागता एयरपोर्ट् परीक्षणम् कोरोनामहामार्याः अधिकप्रभावितेभ्यः राज्येभ्य दिल्ली प्राप्तानां यात्रिणाम् अद्य प्रभृति वायुयानस्थानके कोरोनापरीक्षणव्यवस्था प्रारब्धा येष् यात्रिष् कोरोनामहामार्याः पृष्टिः भविष्यति ते स्वास्थ्यमन्त्रालयनिर्देशानाम् अन्पालनं करिष्यन्ति यात्रिणः परीक्षणं विना वायुयानस्थानकं त्यक्तुं न शक्ष्यन्ति असम पश्चिमबंगाल असम पश्चिम बंगालयोः विधानसभानिर्वाचनानां श्वस्तनद्वितीय चरणाय मतदानस्य सर्वाः आवश्यकसज्जाः पूर्णाः सन्ति निर्वाचनप्रक्रियायाः पारदर्शितां विश्वसनीयतां च सुनिश्चेत् सर्वेष् मतदानकेन्द्रेष् मतदानप्रष्टिचिटिकायाः अपि व्यवस्था भविष्यति कोविड् महामारीकारणेन निर्वाचन आयोगः मतदानकेन्द्रेष् एकसहस्रं मतदातृणाम् आगमनाय अनुमति प्रदत्तवान् अस्ति इतः प्राक् साधैकसहसं मतदातृभ्यः अनुमतिः आसीत् आयोगः कोविड्संक्रमितानां दिव्याङ्गानां तथा च अशीतिवर्षेभ्यः वयोधिकेभ्यः जनेभ्यः डाकमतपत्रद्वारा मतदानस्य व्यवस्थां कृतवान् अस्ति प्रत्येकं मतदानकेन्द्रे दिव्याङ्ग वृद्धसहितेभ्यः समान्यमतदातृभ्यः अपि आवश्यक जनसुविधानां व्यवस्था सुनिधिता अस्ति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 यदि मतदातुः तापमानं निर्धारित मानदण्डात् उपरि भविष्यति चेत् तर्हि तस्य वारद्वयं परीक्षणं भविष्यति यदि इदं समानस्तरे एव तिष्ठति तर्हि मतदात्रे चिटिकां प्रदाय मतदानस्य अन्तिमहोरायां मतदानं कर्तुं कथयिष्यते असमस्य त्रयोदशजनपदेष् नवत्रिंशत् विधानसभासनेभ्यःषड्विंशतिः महिलाः सहिताः आहत्य पञ्चचत्वार्रिंशदधिकविशतं प्रत्याशिनः निर्वाचनरणे सन्ति

पश्चिमबङ्गाले द्वितीयचरणे त्रिंशदासनेभ्यः नवदश महिलाभिः सहिताः एकसप्तत्युत्तरैकशतं प्रत्याशिनः स्पर्धन्ते अस्मित्राज्ये अष्टस् चरणेष् निर्वाचनानि आयोज्यन्ते

कंबिनेट पीएलआई केन्द्रीयसर्वकारेण प्रोडक्शन् लिंक् इंसेंटिव स्कीम् इति योजनान्तर्गतं नवशताधिक दशसहस्रकोटि रूप्यकाणि खाद्यप्रसंस्करणक्षेत्राय स्वीकृतानि वार्ताहैर सह संवादे सूचनाप्रसारण मन्त्री प्रकाशजावडेकर केन्द्रप्रशासनस्य निर्णयविषये सुचितवान् वाणिज्योद्योगमन्त्री पीयूषगोयल उक्तवान् अनेन निर्णयेन कृषकाणाम् आयवर्धनं भविष्यति तथा च तेभ्य व्यापकावसरा अपि उद्घटिता भविष्यन्ति इयं योजना षट्स् वर्षेष् क्रियान्विता भविष्यति अनेन द्विसहस्रसप्तविंशतिवर्ष यावत् सार्धद्विलक्ष जनाः वृत्त्यवसरं प्राप्स्यन्ति स््रचिप्रमुख सैन्यप्रमुख जनरल् एम् एम् नरवणे सबलं प्रतिपादितवान् यत् भारतम् अस्य भूमे अंशमात्रमपि चीनाय न प्रत्यर्पितवद् अस्ति सैन्यप्रमुख उक्तवान् गतमासे जातात् सैन्यापसारणात् अनन्तरं लद्दाखक्षेत्रे शान्ति अस्ति

मोदी देवेगौड़ा अद्य प्रधानमन्त्री नरेन्द्रमोदी भूतपूर्व प्रधानमन्त्रिण एच् डी देवेगौड़ावर्यस्य सममेव तस्य पत्न्या च स्वास्थ्यस्थितिं ज्ञातवान् अवधेयास्पद यत् गौड़ावर्येण साकं तस्य पत्नी अपि कोरोनापीड़िता अस्ति प्रधानमन्त्री उभयो शीघ्रं स्वास्थ्यलाभाय प्रार्थनाम् अकरोत् आरबीआई भारतीयरिजर्वबेंकेन अद्य अवित्तकोषीयसंस्थाद्वारा प्रदीयमानानां भिन्नानां ऋणानां कुसीदप्रतिशतं पंचदश आधारांकमितं न्यूनीकृतम्